स्मिन् क्षेत्रे ग्रणीसता भारतेन चिरमेव महती सफलता प्राप्स्यते कोविड महामारीं रोद्धुं दीयमानानां सूच्यौषधावाप्तानां संख्या सार्धैककोटिमिता प्राय जाता भारत पेट्रोलियम कॉर्पोरिशन बोर्ड नामाख्यया संस्थया नुमालीगढस्थात् तैलपरिशोधनसंयंत्रात् स्वभागस्य षड् पंच दशमलवोत्तर एकषष्टि प्रतिशतं प्रतिभागं पंचसप्तत्यधिक ष्टशतोत्तर नव सहस्रकोटि रूप्यकेष् विक्रयणाय सम्मति दत्ता

स्मिन् क्षेत्रे ग्रणीसता भारतेन चिरमेव महती सफलता प्राप्स्यते

तेन भणितं यत् समुद्रीय क्षेत्रेषु निवेशार्थं नैका पदक्षेपा समुत्यापिता यै आत्मनिर्भर भारत निर्माणस्य लक्ष्यं प्राप्तुं शक्यते

प्रधानमन्तिणा प्रोक्तं यत् सागरमाला योजनान्तर्गतं द्वयशीति ब्र्द डालरात्मकराशे चतुर्सप्तत्यधिक पंचशतं परियोजना संकेतिता

सम्मेलने तेन सह डेनमार्क देशस्य परिवहन मन्त्री बैनी एंगलबर्खवर्य गुजरात आन्ध्रप्रदेश राज्ययो मुख्यमन्त्रिणौ केन्द्रीय मन्त्री धर्मेन्द्र प्रधान मन्सुख मांडविया च उपस्थिता आसन् कोविड द्यतनम् कोविड महामारीं रोद्धुं दीयमानानां सूच्यौषधावाप्तानां संख्या सार्थैककोटिमिता प्राय जाता

यत्र हि प्रथमे चरणे स्वास्थ्यकर्मिण प्रथमपंक्ति्या योद्धार आसन् चलायमाने च द्वितीये चरणे षष्ट्यधिक आयुष्मन्तः वृद्धाः सूच्यौषधं प्राप्स्यन्ति सम्प्रतिं यावत् कोरोणास्वस्थतामिति प्रवर्ध्य सप्तनवतिदशमलव शून्य सप्त मिता जातास्ति विगत चतुर्विंशति होरासु सार्धद्वादशसहस्रं प्राय जना स्वस्थीभूय गृहं प्रत्यावर्तिता

कोविड रेयान विश्वस्वास्थ्यसंघटनस्य निदेशकेन डॉ माइकल रेयान वर्येण प्रतिपादितं यत् वर्षान्तमपि कोविड महामार्या मुक्ते विचार नोचित

तेनोक्तं यत् विषाणावुपरि कथंचित् नियंत्रणं प्राप्तमस्ति परं सार्धमासं यावत् आगतया न्यूनतयानन्तरं पुन तीव्रताऽपि दरीदृश्यते संस्कृतवार्ताया संस्करणमिदं इदानीम् आकाशवाणीत प्रसार्यते

प्रसारणमाध्यमोऽयं सदनद्वयस्यैव प्रसारणं भिन्नतयैव प्रसारयिष्यते विषयेऽस्मिन् एकीकरणाय गठिताया समित्या प्रस्तावित प्रतिवेदनानुसारेण राज्यसभाया सभापतिना एमवेंकैयानायड्र वर्येण सह लोकसभाध्यक्षेण ओमबिडलावर्येण च संयुक्तरूपेण निर्णयोऽयं स्वीकृत भारत पेट्रोलियम् भारत पेट्रोलियम कॉर्पोरेशन बोर्ड नामाख्यया संस्थया संस्थया नुमालीगढस्थात् तैलपरिशोधनसंयंत्रात् स्वभागस्य षड् पंच दशमलवोत्तर एकषष्टि प्रतिशतं प्रतिभागं पंचसप्तत्यधिक ष्टशतोत्तर नव सहस्रकोटि रूप्यकेषु विक्रयणाय सम्मति दत्ता

संयुक्त राष्ट्र संघेन सचेतितं यत् यदि म्यामां देशीयसेना आन्दोलनकर्तृन् निश्शस्त्रजनान् पत्रकारान् विरुद्धय च बलप्रयोगं कुर्वन्ति तर्हि संयुक्त राष्ट्रेण कठोरतमा पदन्यासा समुत्थापयिष्यन्ते

कार्यक्रमोऽयं नवदेहल्यां मन्तिणा दृश्य श्रव्य परान्तर्जालीय माध्यमेन व्यदधात् उभयोः उपक्रमयोः संरचना दिव्यांगानां सशक्तिकरणात्मकेन विभागेन विहितास्ति श्री गहलोतवर्येण प्रधानमन्त्रिण दिव्यांगजनेभ्य कृतसहायता सम्बंधीनां विचाराणाम् उल्लेखपुरस्सरं प्रोक्तं यत् नेन दिव्यांगजना स्वसमस्यादीनां सम्प्रेषणं सारल्येन कर्तुं शक्नुवन्तीति

स प्रवादीत् यत् प्रथम चरणार्थं नामांकन प्रक्रिया मार्च मासस्य नवम दिनांक पर्यन्तं तेषां परीक्षणं च प्रग्रिमे दिने भविता

राज्ये चरणत्रये निर्वाचना वर्तिष्यन्ते यस्मिन् प्रथमचरणस्य निर्वाचनं मार्च मासस्य सप्तविंशति दिनांके भविष्यति